प्रतिरक्षा मन्त्री श्रीराजनाथ सिंह गतदिवसे प्नव्याहरत् यत् प्रशासनं पञ्च विंशत्यधिक द्विसहस्र तम वर्ष यावद भारत षड्विशत्यर्वद डॉलर मुद्रात्मकेन रक्षोद्योगेन सम्पन्नम्पकल्पयित् सर्वथा प्रतिबद्धमस्ति तृती जगत प्रोच्चतम सामरिक क्षेत्रे सियाचिने उत्तरस्या दिशि द्यो द्रापन्नै भीषण हिम स्खलनै नैकानि भारतीय सैन्य स्थात्राणि दृष्प्रभावितानि हिमस्खलन घटनास् अष्टौ जना अवरुद्धा भटै समुद्धता राज्यसभाधिवेशनम् गत दिवसे संसद शीतकालिक संत्रस्य श्भारम्भेण सहैव राज्यसभाया ऐतिहासिकं सार्ध द्वि शत तमम् अधिवेशनं समारब्धम् तत्र विशिष्ट चर्चावधौ राज्यसभाया सार्ध द्विशत वर्ष पूर्ते एितहासिकं क्षणम्पलक्ष्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना प्रोक्तं यल्लोकतन्त्रे संयमस्य संतुलनस्य च कृते राज्यसभाया भूमिका नितरामावश्यकी विद्यते यद्यपि स अवदत् यत् संयमनस्य अवरोधनस्य च मध्ये विभेद सभासदिभ नूनं सततमवधेय राजनाथ थाईलैण्डम् प्रतिरक्षा मन्त्री श्रीराजनाथ सिंह गतदिवसे पुनर्व्याहरत् यत् प्रशासनं पञ्च विंशत्यधिक द्विसहस्र तम वर्ष यावद् भारत षड्विंशत्यर्बुद डॉलर मुद्रात्मकेन रक्षोद्योगेन सम्पन्नम्पकत्पथित् सर्वथा प्रतिबद्धमस्ति स गतदिवसे थाईलैण्डस्य राजधान्यां बैंकॉक नगर्यां वाणिज्य संगोष्ठीमेकां सम्बोधयति स्म

प्राप्त विज्ञप्तेरन्सारि हिमस्खलन घटनास्वेतासु अष्टौ जना अवरुद्धा

प्रतिरक्षा सूत्रै आकाशवाणी विज्ञापिता यद् अराति सैन्यानाम् आक्रमणस्य प्रमुखाणि लक्ष्याणि भारतीय सैन्याना सीमाप्र वर्तीनि स्थात्राणि शाहपुर किरनी क्षेत्रस्थानि नागरिक वृन्दानि च अवर्तन्त

हरियाणा हरियाणा प्रशासनेन राज्ये आप्रवासि भारतीयानां निवेशाय युवाजीविकायै सर्वविध कल्याणाय च वैदेशिक सहयोगो नाम क्को नूतनो विभाग प्रतिष्ठापथिष्यते त्विद विषयको निर्णयश्च गतदिवसे चण्डीगढे राज्य मुख्यमन्त्रिण मनोहर लाल खट्टरस्य आध्यक्ष्ये सम्पन्ने मन्त्रि मण्डलीयोप वेशने गृहीत